सेनाध्यक्ष जनरल बिपिन रावत उक्तवान् यत् पाकिस्तानीय आतंकिसमूह पुनरेकदा सक्रिय

जम्मूकश्मीरारक्षिबलेन जम्मूकश्मीरस्य किश्तावाडजनपदात् विविधातंकि कृत्येष् संलिप्ता त्रय आतंकिन निगडीक़ता

तत्रासौ संय्क्तराष्ट्र महासभाया चत्स्सप्तति तमम् अधिवेशनं सम्बोधयिष्यति य्गपदेव भूरि दवैपाक्षिकेष् बहपाक्षिकेष् च सम्भाषणोपवेशनेष्वपि सहभागं करिष्यति प्रधानमन्त्रिणो यात्राया वृत्तांकनार्थ गतेन अस्माकीनेन वार्ताहरेण प्रोदित यत् न्यूयॉर्कनगरे प्रधानमन्त्रिण प्रथमदिवसीय कार्यक्रम अतिविशिष्ट अस्ति पर्यावरण संरक्षण संत्लन विधानपरायां संयुक्तराष्ट्रमञ्चस्य समित्यामपि असौ भागं भजिष्यति

आतंकवाद विषयमवलम्ब्यासौ शिखर नेतृभि मन्त्रयिष्यति उभय पाक्षिकोपवेशनान्यपि आचरिष्यति प्रधानमन्त्री कतरदेशस्य अमीरं इटल्या प्रधानमन्त्रिणं नाईजरस्य राष्ट्रपतिं नाम्बिबीयाया मालदीवस्य च राष्ट्रपती चापि मेलिष्यति प्रधानमन्त्री संयुक्त राष्ट्र मुख्यालये गांधी सौरोजा उद्यानमपि उद्घाटयिष्यति ततश्चासौ गान्धि शान्ति उद्यानमपि उद्धाटयिष्यति सेनाध्यक्ष सेनाध्यक्ष जनरल बिपिनरावत उक्तवान् यत् बालाकोटातंकिसमूह प्नरेकदा सक्रिय जात भारतीयसेना किदृशीमपि प्रतिकृलां स्थितिं सम्मुखीकर्त् सदैव सन्नद्धास्ति अद्य चेन्नय्याम् अधिकारिप्रशिक्षण अकादम्या कार्यक्रमात् पृथक् वार्ताहरैस्साक संभाषमाणेन तेन प्रतिपादितं यत् बालाकोटातंकि शिविराणि भारतीयसेनाभि कञिच्द कालपुर्वमेव विनष्टानि आसन् परं ते आतंकिसमूहा प्नरेकदा सक्रिया जाता सन्ति

इमे जम्मूकश्मीरस्य किश्तवाड जनपदे भाजपाया राष्ट्रिय स्वयं सेवक संघस्य च नेतृदवयस्य हत्यायामपि संलिप्ता आसन् जम्वां वार्ताहर सम्मेलनं सम्बोधयता जम्मूक्षेत्रस्य आरक्षिमहानिदेशकेन मुकेश सिंहेन प्रत्यपादि यत् निगडितेष् त्रिष्वपि आतंकिष् म्ख्य षड्यन्त्रकर्तारं निसार अहमद शेखं समेत्य निषाद अहमदः आजाद हसैनश्च किस्तवाड जनपदस्यैव वास्तव्या सन्ति